सा ब्रूतखिनूतनभारतस्य स्वप्न साकारयितुं प्रशासनम् उद्योगजगता सह युक्त भविष्यति

प्रधानमन्त्री श्रीनरस्त्रिमोदी त्रयोविंश विनांक आकाशवाणीत मन की बात कार्यक्रमस्त्रिकीयान् विचारान् साक्षात् प्रस्तौष्यति

भारतं प्रकरणक्ष्मिन् विषाणुनिरसनाय चीनदश्तिय साहाय्यम् आचरति वित्तमन्त्री वित्तमन्त्रिणा निर्मलासीतारामन्वयर्या उक्तं यत् प्रशासनं प्रधानमन्त्रिण नूतनभारतस्य स्वप्नं साकारयितुं उद्योगजगतसहितं सर्वेषां पक्षाणां सहयोग स्वीकरिष्यति अद्य कोलकातायां व्यापारोद्योगजगत प्रतिनिधिभि सह आयव्ययसंकल्पनाविषयोपरि चर्चा कुर्वन्ती असौ उक्तवती यत् प्रशासनस्य भूमिका प्रौद्योगिक्या समुपपादनाय भविष्यति

एतष्ट्री न्यायालयक्ष्म प्रतुर्विशत्युत्तरैकशतं पीठानां पुरस्तात् सार्द्वत्रयोदशसहस्रप्रकरणानि प्रस्तुतानि आसन् यक्ष्म प्राय नवसहस्रप्रकरणानि समाधानं प्राप्तानि वर्तन्त एक भारत श्रष्टीभारतम् सुचनाप्रसारणमंत्रालय श्व प्रभृति आरप्स्यमाणस्य अष्टादशादिवसय्तस्य विशिष्टस्य एक भारतं श्रृष्ट भारतम इत्यस्य आयोजनं सम्पूर्णेंडपि दद्वावितनोति अभियानमिदं अस्य मासस्य अष्टाविंशतिदिनांकपर्यन्तं प्रवर्तयिष्यति अस्य अभियानान्तर्गतं सर्वेषां राज्याणां क्विशासितप्रदर्शना च मध्यप्रिहनमुद्लाच सामंजस्यपूर्णा संस्थापना सुदृढीकृत्य राष्ट्रियैकता विवर्धन वर्तत शीडशोत्तरद्विसहस्रतम वर्ष प्रधानमन्त्रिण अस्य कार्यक्रमस्य शुभारम्भ विहितो आसीत

तस्य जीवनं सांस्कृतिकजागरणाय आध्यात्मिकोत्थानाय निर्धनतमाना सद्धावै च समर्पितमासीत्